लीबियांयां अद्य प्रात त्रिपोल्यां शरणार्थिजनानां कृते निर्मित केन्द्रे विमान विस्फोटाक्रमणे न्यूनातिन्यूना चत्वारिंशत् जना मृता त्रिंशत्यधिकशतम् जना व्रणिता जाता आईसीसी विश्व चषक क्रिकेट स्पर्धायां इंग्लैण्ड देश न्यूजीलैण्डदेशेन सह क्रीडति

स अद्य कश्मीर जम्मू मातावैष्णोदेवी क्लस्टर विश्वविद्यालयानां जम्मूनगरस्य अन्यविश्वविद्यालायानां च क्लपतिजनै सह एकास्मिन् उपवेशने सम्बोधयति स्त लीबिया लीबियांयां अद्य प्रात त्रिपोल्यां शरणार्थिजनानां कृते निर्मित केन्द्रे विमान विस्फोटाक्रमणे न्यूनातिन्यूना चत्वारिंशत् जना मृता त्रिंशत्यधिकशतम् जना व्रणिता जाता लीबियाया संय्क्त राष्ट्र समर्थित प्रशासनं अवादीत् यत् आक्रमणस्य दोषी खलीफा हिफ्तरस्य लिबियन नेशनल आर्मी इति वर्तते

महाराष्ट्र महाराष्ट्रस्य रत्नागिर्या चिपल्न ताल्का स्थाने तिबरे सेत् भ्रंशाद् सप्त जना मृता अपि च चतुर्विशति जना विलुप्ता सन्ति अस्माकं वार्ताहरानुसारेण मृतकानां संख्या इतो ंपि वर्धित्म् शक्ष्यन्ते स्थानीय प्रशासनं अस्चयत् यत् जलाप्लावेन न्यूनातिन्यूना त्रयोदश गृहाणि प्रध्वंसानि नागरिक प्रशासनं आरक्षिबलानि एन डी आर एफ इत्यस्य दलानि साहाय्योद् धारकार्याणि क्वन्ति विगत द्विदिवसेष् अतिवृष्टिकारणात् चत्र्रिशत् जना मृता घटनास् विद्य्त पतनं भितिपतनं भ्रित्तिभ्रंश इत्यादय कारणानि सन्ति

क्रिकेट आईसीसी विश्व चषक क्रिकेट स्पर्धायां इंग्लैण्ड देश न्यूजीलैण्डदेशेन सह क्रीडति आकाशवाणीत स्पर्धाया साक्षात् प्रसारणं भवति